आर्थिक समीक्षा एकोनविंशति विंशति उत्तर द्वि सहस्रतम वर्षस्य आर्थिक समीक्षायां सकल गृहोत्पाद वृद्धि प्रतिशतं सप्तमिता अन्मानितास्ति भारतीय अर्थव्यवस्था अष्टादशोत्तर एकोनविंशत्युत्तर द्वि सहस्रतमे वर्षे प्रतिशत दशमलवोत्तर अष्टाधिक षण्मिता समेधिष्यते इति अन्मीयते सामान्य रूपेण आर्थिक स्थैर्य यथावस्थमेव स्थास्यति

वित्त संकल्पना वित्तमन्त्री श्रीमती निर्मला सीतारमण श्व केन्द्रीय वित्त संकल्पना पत्रं प्रस्तोष्यति एतद्धि मोदिन द्वितीय कार्यकालस्य प्रथमं वित्त संकल्पना पत्र वर्तते जम्मू कश्मीर श्व प्रस्तोष्यमाणे केन्द्रीय वित्त संकल्पना पत्रे तत्रत्या जना भूरि आशान्विता सन्ति सविशेषञ्च महिला आशास्ता सन्ति यदनया वित्त संकल्पनया महार्यता न्यूनीभविष्यति

यत्र जनै आशास्यते यत् वित्त संकल्पना पत्रं सन्त्लितं भविष्यति

ध्यानास्पदं वर्तते यत् साम्प्रतं यावद वित्तकोषेष् परीक्षा विधान प्रसंगे केवलं हिन्दीभाषा आंग्लाभाषा चेति भाषाद्वयी एव मानिते आस्ताम् एतस्मिन् विषये दक्षिणभारतस्य कतिपयै सांसदै याचनापि कृता आसीत् यद् वित्तकोषे आजीविकार्थं परीक्षा स्थानीयभाषास् अपि भवेदिति सम्प्रति परीक्षेयं असमी बांग्ला गुजराती कन्न्ड कोंकणी मलयालम मणिप्री मराठी ओडिया पञ्जाबी तमिल तेल्गु उर्दू चेति क्षेत्रीयास् भाषास्वपि समनुष्ठास्यते जगन्नाथरथ यात्रा विश्व प्रसिद्ध जगन्नाथ रथ यात्रा अद्य ओडिशाया पूर्यां समारब्धा लक्षशो भक्तजना अद्य बलभद्र सुभद्राभ्यां सह भगवतो जगन्नाथस्य दर्शनार्थं तत्र पुर्याम् एकत्रिता सन्ति जगन्नाथरथयात्रा रथ महोत्सव नाम्नापि समभिधीयते द्वादश्या शताब्दा समारव्धा इयं यात्रा साम्प्रतमपि महदुल्लासेन आमान्यते तत्र हि भक्तजनानां सुरक्षार्थं सुरक्षाया सुदृढा प्रबंधा विहिता सन्ति क्रिकेट विश्वचषकीय स्पर्धा आई सी सी विश्वचषकीय क्रिकेट स्पर्धायाम् अद्य वेस्ट इण्डीज अफगानिस्तान दलयो मध्ये क्रीडा प्रचलति